भारतदेशेन न्यूनतमकाले कोटित्रयाधिकेभ्यः जनेभ्यः सूच्यौषधं प्रदाय सफलता प्राप्ता लोकसभाध्यक्षः ओमबिडला कथितवान् यत् संसदा अन्यैः संसद्भिः पारितविषयेष् अपि विचारविनिमयः कर्तव्यः इति पर्यावरणमन्त्री प्रकाशजावडेकरः अवदत् यत् विश्वेन जलवायपरिवर्तन न्यनी कत् नीत उपायेभ्यः भारतस्य नेतृत्वाधायि भूमिका स्वीकृता

फिनलैण्ड अद्य प्रधानमन्त्री नरेन्द्रमोदी आभासीयमाध्यमेन फिनलैण्डदेशस्य प्रधानमन्त्रिणा सैनामॉरेनेन साकम् उपवेशनम् विधास्यति अस्मिन् अवसरे उभौ नेतारौ द्विपक्षीय प्रकरणानाम् अन्ताराष्ट्रियविषयाणां च उपरि चर्चा करिष्यतः यस्मिन् विनिवेशः पर्यावरणम् शिक्षा नवाचाराणि विज्ञानादयः विषयाः चर्चायाः केन्द्रे भविष्यन्ति कोविड स्च्यौषधम् भारतदेशेन न्यूनतमकाले कोटित्रयाधिकेभ्यः जनेभ्यः सूच्यौषधं प्रदाय सफलता प्राप्ताजनवरी मासस्य षोडशदिनांकतः समारभ्य सप्तदशलक्षाधिक त्रिकोटिनजेभ्यः ह्यस्तनं यावत् सूच्यौषधानि प्रदत्तानि पत्रकाराय केन्द्रसर्वकारेण च कोविडेन हतेभ्यः पत्रकारेभ्यः पत्र्वलक्षरुप्यकाणां सहायता राशिः प्रदानस्य सुनिर्णयो निर्णीतः

अयं गणः चिकित्सीयदृष्टया हरिद्वार कम्भायोजनस्य निरीक्षणंकृत्वा प्रतिवेदनं प्रदास्यति

ओमबिडला लोकसभाध्यक्षः ओमबिडला कथितवान यत्संसदा अन्यैः संसद्भिः पारितविषयेष् अपि विचारविनिमयः कर्तव्यः इति

जावडक्कर पर्यावरणमन्त्री प्रकाशजावडेकरः अवदत् यत् विश्वेन जलवायुपरिवर्तनं न्यूनी कतुँ नीत उपायेभ्यः भारतस्य नेतृत्वाधायि भूमिका स्वीकृता

अस्याः क्रीडायाः सदृष्टसाक्षात्प्रसारणं कि मि रेनबो इति आकाशवाण्याः प्रसारणमाध्यमेन अपि भविष्यति